प्रधानमन्त्री नरद्वि मोदी कोलकातायाः दिवसद्वयात्मिकायाः आधिकारिक यात्रायाः प्रसंगखिद्य तत्र संप्राप्नोति

नक़वीराजनैतिकदलानि अल्पसंख्यक विषयाणां क्ट्रीय मन्त्रिणा मुख्तार अब्बास नक्रविना उक्तं यत् कतिपयानि राजनैतिक दलानि यदा संशोधित नागरिकताधिनियम विषयज्ञिनान् स्वच्छिया समाश्वासित् न शक्तानि तदा तानि एतद्विषयश्रिथ्या प्रचारखिलग्नानि जातानि तस्पिक यत् तैः दलैः स्वकार्यसिद्ध्यर्थ युवानः प्रयुज्यन्त श्री नक्रवी गतदिन सखनऊ नगर एकस्मिन् संचार माध्यमीय सम्मस्मिड संशोधित नागरिकताधिनियमविषयम् उद्दिश्य अभिभाषतस्मि

अपरतः सायंकालामिलरिविम् पार्कस्थलस्रीन्द्र सर्ती प्रधानमन्त्री एकां विशिष्टां ध्वनि प्रकाश प्रदर्शनीम् अपि समुद्घाटयिष्यति

श्री शाहः अद्य प्रातः गान्धीनगर ज़हात्म मन्दिर ज़िजरातारक्षिबलस्य राज्य गृहमन्त्रालयस्य च नैकासां परियोजनानाम उद्घाटनं विधास्यति

क्रिक्ट् भारत श्रीलङ्योर्मध्यआआयोजितायाः स्पर्धात्रयात्मिकायाः अन्ताराष्ट्रियायाः विंशति प्रति विंशति क्षप्टिवक्रीय क्रिक्ट्रिक्रीडा मालिकायाः तृतीया अन्तिमा च स्पर्धा गतसायं पृणजिगयाँ भारत अष्टसप्ति धावनाड़कैः विजिता

भारतस्य शार्दल ठाक्रः स्पर्धा प्रुषः नवदीप सैनी च श्रङ्खला पुरुषो घोषितः